अद्य स्वास्थ्य मन्त्रिणा डॉक्टर हर्षवर्धनेन कोविड नवदश महामार्याः द्वितीयं सूच्यौषधं सम्प्राप्तम उक्तं च जना भ्रामक सूचना मा विश्वसेयु नागर विमानन महानिदेशालय आदिशत ा यत ा सर्वोणि विमानपत्तनानि कोविड सम्बद्ध दिङ्निर्देशा परिपालयन्त् नवम हार्ट ऑफ एशिया सम्मेलने विदेशमन्त्री एस जयशंकर एशिया हृद् देशान अफगानिस्तानदेशे स्थायि शान्तिं वर्धयितुं उक्तवान मराठीलेखक डॉशरणक्मार लिम्बाले सनातन इति प्स्तकस्य कृते दविसहस्न विंशति वर्षीयं सरस्वती सम्मानं प्राप्स्यति

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीक्वन्त् मुखावरकं सन्धारयन्त् सामाजिकदूरताम् परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्त् असम पश्चिमबंगाल निर्वाचनानि असम पश्चिम बंगालयोः विधानसभा निर्वाचनानां दवितीयचरणाय प्रचाराभियानम अदय समाप्तम ि एतयोः उभयोः राज्ययोः तृतीयचरणाय अपि च केरल तमिलनाडुभ्यां केन्द्रशासित प्रदेशे प्रदद्वचेर्याम एकचरणे भाविमतदानस्य कृते प्रचाराभियानानि तीव्रगत्याप्रवर्तन्ते दवितीयचरणे असमस्यनवत्रिंशत्विधानसभासनेभ्यःषड्रिंशतभ्रमहिलाभिः सहिताःपञ्चचत्वारिंशत्प्रत्याशिनः निर्वाचनेष् स्पर्धन्ते वर्तमाने प्राम्ख्येन घटबन्धनद्वयं भारतीय जनता पार्टीतिदलस्य नेतृतब्बय्क्तराष्ट्रिय जनतांत्रिक घटबन्धनं कांग्रेसनेतृत्वयूक्त महाघटबन्धनंच निर्वाचनेष् स्पर्धते अस्मिन ाचरणे भारतीय जनता पार्टीति दलस्य चत्स्त्रिंशत्त्त कांग्रेसदलस्यअष्टाविंशतिः असम जातीय पार्टी इत्यस्य नवदश एआईयूडीएफदलस्यसप्त असम गणपरिषदःषड् बोडोलैंड पीप्ल्स फ्रंट इत्यस्य चत्वारःषड्सप्तत्य्तरैकशतं निर्दलीयाःप्रत्याशिनः निर्वाचनरणे परस्परं स्पर्धन्ते पश्चिमबङ्गालेद्वितीयचरणेत्रिंशदासनेभ्यःनवदश महिलाभिः सहिताःएकसप्तत्य्तरैकशतं प्रत्याशिनः स्पर्धन्ते

सत्तारूढं अखिल भारतीय तृणमूल कांग्रेसदलंतथा च भारतीय जनता पार्टीति सर्वेष्त्रिंशदासनेष्स्पर्धतेतत्रैव कांग्रेस वामपन्थि दल इंडियन सैक्यूलर फ्रंट च संय्क्रक्सरूपेण निर्वाचनेष् स्पर्धन्ते सीपीआईएम इति दलंपञ्चदश कांग्रेसदलं नव बहजन समाज पार्टी सप्त सीपीआई दवयोःतथा च ऑल इंडिया फॉरवर्ड ब्लॉक आरएसपी इतिच एकैकासनयोःस्पर्धन्ते

स्वस्थ्य मन्त्रालयेन प्रतिपादितं यत ह्य द्व्यशीत्यधिक पंचलक्षजनै सूच्यौषधम इदं सम्प्राप्तम तत्रैव कोरोना महामार्या स्वस्थता प्रतिशतता अध्ना चत्नवति दशमलव एक अष्टमिता पंजीकृता मन्त्रालयेन निगदितं यतः विगते अहोरात्रे सप्तत्रिंशत्सहस्त्रं जनाः स्वस्थीभूताः अपि च एकसप्तत्यधिक दविसहस्त्रं रोगिण मृत्यूम उपगता ध्यातव्यमस्ति यत अनेकेष् राज्येष् संक्रमितानां जनानां संख्या प्रतिदिनं वृद्धिमाअधिगच्छति

हर्षवर्धन अदय नवदेहल्या हृदय रोग संस्थाने स्वास्थ्य मन्त्रिणा डॉक्टर हर्षवर्धनेन कोविड नवदश महामार्या दवितीयं सृच्यौषधं सम्प्राप्तम स न्यगादीत यत जना सृच्यौषध सम्बदध विषयेष् मिथ्या प्रचारं न विश्वसन्त् अग्रे तेनोक्तं यताप्त्रप्रद्यौषध प्रदानान्तरं संक्रमितानां संख्या न्यूनी जाता

अदय एकस्याम अधिसूचनायाम महानिदेशालय प्रोक्तवान यत केष्चित विमानपत्तनेष् महामार्या दिङ्निर्देशान ा जना न परिपालयन्ति

येन देशे अस्मिन शान्ति स्थापिता भवेत अवधेयास्पदं वर्तते यत ा हार्ट आॅफ एशिया इस्ताम्बुल प्रक्रियाया स्थापना एकादशाधिक द्विसहस्त्रतमे वर्षे अभवत अस्मिन भारतस्य भूमिका महत्वपूर्णा अस्ति नड्डा भाजपादलस्य राष्ट्रियाध्यक्ष जेपी नड्डा अवदत प्यत प्रधानमन्त्री नरेन्द्रमोदी सर्वेषां जनानां सर्वविध विकासाय कार्य करोति अद्य बिलासीपारायां निर्वाचनसभां सम्बोधयन ा श्रीमान ा नड्डा उक्तवान ायत ास्वे जना विकास योजनानां लाभं प्राप्न्वन्ति कांग्रेसस्य भर्त्सनां कर्वन ास उक्तवान ा यत क्रांग्रेसदलं तेभ्य समर्थनं यच्छति ये असमचायस्यद्ष्प्रचारं कृतवन्त प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी नरेशनलकांफ्रेंस दलस्य अध्यक्षं फारूख अब्दुल्लां प्रति शीघ्रं स्वास्थ्याभाय स्वश्भाशंसा प्रकटितवान अवधेयं वर्तते यत फारूख अब्दुल्ला कोरोना पीडित अस्ति भारत आस्ट्रेलिया भारत ऑस्ट्रेलियादेशयो मध्ये निरस्त्रीकरणं परमाण् प्रसार निरोधं निर्यातनियन्त्रणं च अभिलक्ष्य षष्ठ चरणीय संवादः अद्य दृश्यश्रव्य प्रणालिकया समाचरितः उभौ पक्षौ निरस्त्रीकरणस्य परमाण्क्षेत्रे रसायनक्षेत्रे च स्वविचारविनिमयं कृतवन्त

ला पेरोज्इत्याख्येजलसैन्याभ्यासे ऑस्ट्रेलिया जापान संयुक्तराज्य अमेरिका च भागं ग्रहीष्यन्ति परन्त् भारतम अस्मिन प्रथमवार भागं गृहणाति इदं महत्त्वपूर्ण चरणम इति ृष्ट्या ृष्यते

प्रस्कारान्तर्गतं पंचदशलक्षरूप्यात्मकं राशि फलकं च प्रदीयते सरस्वतीसम्मानं देशस्य साहित्यक्षेत्रे उत्कृष्टतमं सम्मानम अस्ति